भारतीय चिकित्सानुसन्धान परिषदा विवर्धमानस्य कोरोना संक्रमण प्रसारस्य नियन्त्रणाय अद्य स्वीया परिष्कृता कार्यनीति प्रख्यापिता दिल्या मुख्यमन्त्रिणा अरविन्द केजरीवालेन संसूचितं यत् दिल्या द्वि सप्तति राशन पत्र धारकेभ्य प्रशासन श्ल्कमुक्त खाद्यान्नं प्रापयिष्यति

प्रधानमन्त्री चतुर्दश होरात्मक जनता कर्फ्यू इति जनता बहिर्गमन निषेधः देशे श्व प्रात सप्तवादनत रात्रौ नववादनं यावत् अन्पालयिष्यते कोरोना विषाणो प्रवर्धमानं प्रकोपं नियन्त्रित्ं जनता कर्फ्यू परामर्शं पालयित्ं प्रधानमन्त्रिणा नरेन्द्रमोदिना ऐषम ऊनविंशति दिनांके स्वीये राष्ट्र सम्बोधनावसरे देशवासिनो निवेदिता आसन् देशस्य विभिन्नै सम्दायै प्रधानमन्त्रिण उक्त परामर्श समर्थितोऽस्ति प्रतिकूल परिस्थितौ अस्यां मुक्त हृदयेन देशवासिनां समर्थनार्थं श्रीमोदिना स्वीयाभार प्रकटित प्रधानमन्त्री परामर्श प्रधानमन्त्रिणा नरेन्द्रमोदिना जना अध्यर्थिता प्रोक्तं कोरोना संक्रमण संकटान्नस्थितौ अस्यां जना चिकित्सकानां स्वास्थ्यमन्त्रालयस्य च परामर्शान् अवश्यं अनुपालयेय्ः ट्वीट् सन्देश माध्यमेन प्रधानमन्त्रिणोक्तं सम्पर्क शृन्यावस्थितौ अवस्थानाय व्यवस्थापितवन्तो जना तथाकत् स्निश्चिन्यः अमुनोक्त िवे निर्देशान् अनुपालयन्तो भवन्त निज परिवार मित्राणि नगरं च अभिरक्षित् समर्हिष्यन्ति

केन्द्रीय मन्त्रिमण्डलम् केन्द्रीय मन्त्रिमण्डलेनाद्य मौडिफाइड इलैक्ट्रॉनिक्स मैनुफैक्चरिंग क्लस्टर्स इति योजनायै आर्थिक साहाय्य प्रदानं अन्मोदितम् अनया योजनया देशे विश्वस्तरीयानां आध्निक सौविध्य्तानां चलभाष सन्निभानां वस्तूनां रचनाय यथावश्यकं स्थलं सम्पलम्भयिष्यते इथ्थं योजनेयं देशे बृहत्तम स्तरे वैद्यूदीय वस्तूनां निर्माणाय सहायिका सेत्स्वति नवदिल्ल्यां अद्य वार्ताभिकरणै साधं संवादप्रसंगे केन्द्रीयमन्त्री रविशंकर प्रसाद सर्वमिदं व्यज्ञापयत्

उत्तिदनु सर्वे चिकित्सालया पीडिता जनाश्च निर्दिष्टा यत् श्वासे काठिन्यम् विमेव कथंकारमपि कासम् अस्वस्थतां अनुभवतां रोगिणां कोरोना परीक्षणं अनिवार्यत्वेन भवेत् सम्पर्क साधितानां संक्रमण सन्धिग्धानां परीक्षणं पञ्च चतुर्दश दिवसमन्तरा वारद्वयं आवश्यकमित्यपि व्यज्ञापयत् परिषद

स्वास्थ्य परिवार कल्याण मन्त्रालयेन सद्य प्रकाशितं वक्तव्यानग्णं विंशत्यधिक सम्पर्क साधिता संक्रमण पीडिता स्वस्था जाता

दिल्ली कोरोना प्रवर्धमानं कोरोना संक्रमणं उन्मूलयित्ं राष्ट्रिय राजधान्यां पञ्चतोऽधिक जनानां क्रिस्मिन्नेव स्थाने अवस्थानं निषिद्धम् दिल्या मुख्यमन्त्री अरविन्द केजरीवाल ठित् समुदघोषयत् तेनोक्तं नास्ति साम्प्रतं अत्र पूर्णतोदृशा पिधानस्यावश्यकता स्थितिरस्ति नियन्त्रणाधीना अम्ना संसूचितं यत् दिल्या द्वि सप्तति राशन पत्र धारकेभ्य प्रशासनं श्ल्कमुक्तं खाद्यान्न प्रापयिष्यति खाद्यान्नाथं प्रशासने निभरेभ्य नगरवासिभ्य अध्ना पञ्चकिलोग्रामापेक्षया सार्थ सप्त किलोग्रामं खाद्यान्नं प्रदास्यति प्रशासनम्